राष्ट्रपती रामनाथकोविन्दः स्वीकृतवान सैन्याभिवादनं राजपथे

विदेशेष् अपि भारतगणतन्त्रदिवसमवलम्ब्य अनेका कार्यक्रमा जाजायन्ते महद्त्साहेन

एकसप्ततितमस्य गणतन्त्रदिवसस्योपलक्ष्ये अद्य राष्ट्रियराजधानायां दिल्ल्यां राजपथे भव्यमेकं पथवायुसञ्चनलम् आयोजितम् यस्मिन् देशैतिह्यं सांस्कृतिकविविधतायाः सामरिकशक्तेः च भव्याः शोभाः प्रदर्शिन्यः दर्शकेभ्यः प्रदर्शिताः राष्ट्रपतिना रामनाथकोविन्देन त्रिवर्णराष्ट्रियध्वज प्रसारितः सैन्याभिनंदनं च स्वीकृतम् गणतन्त्रदिवसीयं मुख्यतिथित्वं ब्राजीलदेशस्य राष्ट्रपतिना जाइर मैसियास बोलसोनारो वर्येण स्वीकृतम् ऐषम वर्षे गणतन्त्रदिवससमारम्भे राष्ट्रिय समरस्मारके प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना देशरक्षायै हतिंगतेभ्यः वीरेभ्यः श्रद्धाञ्जलयः अर्पिताः अवसरेऽस्मिन् विशिष्टं भव्यं नव्यं च पथसञ्चलनं विजयचत्रष्कादारभ्य रक्तद्गप्रांगणाभिम्खी अवर्तत गणतन्त्रदिवस लेह नवगठिते केन्द्रशासितप्रदेशे लद्दाखे गणतन्त्रदिवसः भव्यरीत्या आमानितः समारोहस्य आरम्भः हतात्मनां स्मरणपूर्वकेण अभवत् लद्दाखस्य उपराज्यपालेन राधाकृष्णमाथ्रेण लेहयुद्धस्मारकोपरि माल्यार्पणं कृतमं तदन् पोलोग्रांड इत्यत्र तेन त्रिवर्णराष्ट्रियध्वजः प्रसारितः

गणतन्त्रदिवसः जम्मू केन्द्रशासितप्रदेशे जम्मूकश्मीरे जम्मू संभागस्य सर्वेष् क्षेत्रेष् विशिष्टस्रक्षा सहितः गणतन्त्रदिवसः परिपालितः

अनेनोक्तं यत् विगतवर्ष जम्मूकश्मीरस्य जनानांकृते बृहदपरिवर्तनयुक्तं वर्षमासीत् केन्द्रप्रशासितप्रदेशे आतंकवादविषयः सर्वाधिकः समास्यापूर्णः वर्तते परन्तु प्रशासनं विषयस्य अस्य समाप्तीकरणाय कटिबद्धं वर्तते